आकाशवाणीत प्रसारितस्य मन की बात कार्यक्रमस्य षष्टितमे संस्करणे श्रोतृभि सह स्वीयं मनोगतं प्रस्त्वता मोदिना विश्वास अभिव्यक्त यत आगामिनि दशके भारतस्य प्रगतौ विकासे च एकविंशतितमख्रिष्टाब्दे जायमानानां यूनां पूर्ण योगदानं भविष्यति तेन प्रोक्त ं यद् राष्ट्रमाअद्य स्वस्य यूनामाकारणाताअम्बरं स्पर्शयित्ं प्रतीक्षते प्रधानमिन्त्रणा विश्वास प्रकटित यत नवीने दशके यूनां सामूहिक्या शक्त्या देशस्य विकासो भविता प्रधानमन्त्री जम्मू कश्मीरे हिमायत नाम्ना कौशल विकास कार्यक्रमं उल्लेखयन अवदत यत अस्य अनतर्गतं गतदविवर्ष अष्टादश सहस्रय्वभ्यः सप्तदशस् भिन्नेष् भिन्नेष् व्यवसायेष् प्रशिक्षणानि प्रदास्यन्ते

प्राधनमन्त्रिणा जना अध्यर्थिता यत ते स्वदेशजस्य भावनां स्वीकृत्य स्थानीयान उत्पादान एव क्रीणीय् अमित शाह ग़हमन्त्री अमित शाह न्यगादीत ियत िप्रशासनं एतद् स्निश्चयं कर्त् वचनबद्धम अस्ति यत ि अर्द्धसैनिकबलानां सैनिकेभ्य प्रतिवर्ष शतदिवसाय अवकाशा स्यूः यस्मिनप्ते परिजनैः सह समयं यापयेय्ः

शीतबहरी समस्तेष्वपि उत्तर भारतीय क्षेत्रेष् शैत्य प्रकोप सम्प्रति परां काष्ठां स्पृशति ऋत्विज्ञान विभाग व्यज्ञापयत यदेषा शीत लहरी आगामिष् दिवसेष् प्रवर्तिष्यते